नवदिल्ल्या प्रोच्यते यत् प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना कश्मीर विषयमधिकृत्य माध्यस्थ्यमन्ष्ठात्म् अमेरिकीयो राष्ट्रपतिः डॉनल्ड ट्रम्पः नैव निवेदितः केन्द्रीयाऽवीक्षणाऽभिकरणं कस्याश्चिल्लघ् निवेश प्रवव्चनायाः प्रकरणे अन्वीक्षणार्थं ह्यः एकादशस् स्थानेष् सहसा निरीक्षणानि व्यदधात् भारत रशिया देशौ पञ्च विंशत्यधिक द्विसहस्रतम वर्ष यावत पारस्परिकं व्यापारं त्रिंशदर्वृद अमेरिकीय डॉलर मुद्रात्मकं विधातूं नैकेषां समूपायानाम् समाश्रणार्थं सहमतौ जातौ स्तः कर्णाटक संकटम् कर्णाटक विधानसभा गतरात्रौ शासनाधिरूढ दलस्य शक्ति परीक्षणं विनैव स्थगिता ततः पूर्वं सदने नैकधा विधायकानां प्रबल कोलाहल मध्ये विश्वास मत प्रस्तावम् अधिकृत्य चर्चा समन्ष्टिता ततः प्रायशः साधैंकादश वादने शासनाधिरूढ दलस्य विधायकैः आगृहीत यदिदानीमपि नैके सदस्याः प्रस्तावमधिकृत्य निज मन्तव्यं प्रकाशयितृमिच्छन्तीति कृत्वा चर्चेयम् अप्रिम दिवसाय स्थगनीया यद्यपि विपक्षिणा भाजपा वृन्देन तदानीमपि शक्ति परीक्षण सम्पादनार्थम् आगृहीतम् पर विधानसभाऽध्यक्षेण तेषामाप्रहः अस्वीकृतः सदनं च तत्कालं स्थगितम् विदेशमन्त्रालयः ट्म्पः नवदिल्ल्या प्रोच्यते यत् प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना कश्मीर विषयमधिकृत्य माध्यस्थ्यमनष्ठातुम् अमेरिकीयो राष्ट्रपतिः डॉनल्ड ट्रम्पः नैव निवेदितः विदेश मन्त्रालयीयः प्रवक्ता रवीश कुमारः स्पष्टमकरोत् यत् सन्दर्भेडस्मिन् भारतस्याय शाश्वतिकः सिद्धान्तो विद्यते यत् पाकिस्तानेन समं तस्य सर्वेडपि विवाद विषयाः द्वि पाक्षिके स्तरे एव समाधेयाः तेनोदीरितं यत् पाकिस्तानं च तस्य द्वि पाक्षिक सम्बन्धस्य प्नः प्रवर्तनाय प्रथमं पारेसीमातंकवादं परिसमापयेत् रवीशः अप्रे अब्रदीत् यद् देश द्वय मध्ये स्थितानां समेषां विवादास्पद विषयाणां समाधानं शिमला सन्धेः लाहौराभिघोषणायाश्चाधारेणैव सम्भवति

आधिकारिक वक्तव्ये व्याहत यदेतानि सहसा निरीक्षणानि पश्चिम बंगालस्य उत्तरीय चतुर्विंशति परगना जनपदे पटनायाम् अगरतलायां नवदिल्ल्यां च समनुष्ठितानि निरीक्षण क्रमे च नैकानि प्रवञ्चनाधार भूतानि प्रमाण जातानि प्राप्तानि अभिकरणेन इमानि प्रमाण जातानि आधृत्य सम्बद्ध लध् निवेश समवायस्य प्रवर्तकं पार्थ चक्रवर्त्तिनम् अन्यांश्व षड्यन्त्र कारिणो जनान् विरुध्य प्राथमिकी पञ्जीकारिताऽस्ति भारतम् रशिया भारत रशिया देशौ पञ्च विंशत्यधिक द्विसहस्रतम वर्ष यावत् पारस्परिकं व्यापारं त्रिंशदर्वृद अमेरिकीय डॉलर मुद्रात्मकं विधातं नैकेषां सम्पायानाम समाश्रणार्थं सहमतौ जातौ स्तः रशिया देशीयः उप प्रधानमन्त्री यूरी बोरिसोवः गतदिवसे नवदिल्ल्यां विदेश मन्त्रिणम् एस् जयशंकरम् अमिलत्